प्रोक्तं च जनाधिकार संरक्षणार्थं तदीय प्रशासनं सर्वात्मना कृत संकल्पमस्ति

प्रधानमन्त्री प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य कांप्रेस्दलं तत्संयुतिदलं च कट्वालोचितम् प्रधानमन्त्रिणोक्तं यत् दलमेतत् नागरिकता संशोधन विधेयक विषये वृथैव मिथ्या प्रचार पुरस्सरं जनेष् आक्रोशं जनयति देशे अशान्तिमयं वातावरणं चोत्पादयति असौ झारखण्डस्य ड्मका स्थले नैवाचनिकीं जनसभां सम्बोधयति स्मा झारखण्डम् श्व समन्ष्ठीयमानानां झारखण्ड विधानसभा निर्वाचनानां मतदानार्थं सर्वा प्राक् सज्जता प्रपूरिता चतुर्थं एतं च चरणान्तर्गतं चर्त्णां जनपदानां पञ्चदश निर्वाचन क्षेत्रेष् मतदानानि प्रात सप्तवादनत समायोक्ष्यन्ते तत्र हि पञ्चस् नक्सल प्रभावितेष् निर्वाचन क्षेत्रेष् मतदानावसानं त्रि वादने एव भविता यद्यपि दशस् निर्वाचनक्षेत्रेष् मतदानकार्याणि सायं पञ्चवादनं यावत् प्रचलिष्यन्ति आकाशवाणी वार्ताहरान्सारि मुक्तरीत्या निष्पक्षं च मतदानायोजनार्थं तत्र व्यापका सुरक्षा प्रबन्धा प्रकल्पिता सन्ति तत्रैव अस्य मासस्य विंशे दिनांके समायोक्ष्यमाणाय पञ्चम चरणात्मक मतदानाय प्रचाराभियानि सजवं प्रवर्तन्ते

प्रोक्तं च भविष्यतिकाले झारखण्डस्योत्कर्षाय विपक्षिदलेन नैव विनिर्मिता सुष्ठु कार्य योजना असमम् असमस्य मुख्यमन्त्री सर्बानन्द सोनोवाल जनान् पुनरेकवारं समाश्वासयत् प्रोक्तं च जनानाम् अधिकार संरक्षणार्थं तदीय प्रशासनं सर्वात्मना कृत संकल्पमस्ति अम्नोक्तं यत् नागरिकता अधिनियम संशोधन विधेयक विषये विशिष्टो वर्ग एक मिथ्या प्रचारं कुरूते किंच जना अवधारयन्त् तत्प्रशासनं न कथमपि तत्कर्म आचरिष्यति यत् जनताया विरोधे स्यात् राज्य प्रशासनं तथोक्तं प्रकरणं समाधातुं सर्वात्मना प्रयतते तत्रैव मुख्यमन्त्रिण नेतृत्वे प्रतिनिधिमण्डलमेक राज्यस्थितिं विज्ञापयित् यथाशीघ्रमेव प्रधानमन्त्रिणं केन्द्रीय गृहमन्त्रिणं च मेलिष्यति अत्रान्तरे राज्य स्थितौ परिष्कार दृग्गोचरीभृत येन ग्वाहाटी डिब्रगढ़ स्थलाभ्यां अद्य दिवसे संचेतना अपाकृता आसीत् डिब्रगढ़े विमान सेवा अपि प्नरारब्धा अपरत्र मेघालयेडपि नागरिकता संशोधन विधेयकमिमम् अधिकृत्य कतिपय दिनेभ्य प्रवर्तितं विरोध प्रदर्शनानन्तरं अद्य राज्य राजधान्यां शिलौंगे जनजीवनं सामान्यं दृष्टिपथम् आयातम् विषयेऽस्मिन् राज्यप्रशासनं विधानसभाया विशिष्टं सत्रम् समाकारयिष्यति इत्यपि स्निश्चितमस्ति फास्ट टैग व्यवस्था भारतीय राष्ट्रिय राजमार्ग प्राधिकरणेन फास्ट टैग अर्थात् प्रीपेड चार्जेबल टैग इति प्राग्देय मार्ग श्ल्क व्यवस्था अद्य प्रभृति प्रवर्तिता अनया व्यवस्थया मार्गीय श्ल्क प्रदानं स्वचालित रीत्या सम्भविष्यति सर्वेभ्यो वाहनेभ्य प्रणालीयं अनिवार्या भविष्यति आकाशवाण्या सह संवाद प्रसंगे राष्ट्रिय राजमार्ग प्राधिकरणस्य प्रम्ख महाप्रबन्धक अमरेन्द्रर कुमार न्यगादीद यत् अनेन माध्यमेन समयस्य इन्धनस्य च संरक्षणं भविष्यति निर्बाध यातायातार्थं प्रदृषण नियन्त्रणाय च प्रणालीयं सहायिका सेत्स्यति